उच्चतमन्यायालयेन रफाल विमानानां क्रय प्रकरणे पञ्जीकृता प्नर्विचार याचिका निरस्तीकृता गदितं प्नर्विचार याचिका इमा न सन्ति श्रवणाहा हरियाणायाम अदय प्रथमो मन्त्रिमण्डल विस्तारो विहित

प्रसङ्ग सम्बदधा सर्वा अपि प्नर्विचार याचिका शीर्षन्यायालयेन सप्तन्यायाधीश यूतं बहहत्तमं खंडपीठं प्रति प्रेषितमस्ति शीर्षन्यायालयेनोक्तं यत् खण्डपीठमिदं शबरीमला मन्दिरे मस्जिदे च महिलानां प्रवेश प्रतिबन्ध सम्बदधानाम अथ च दाउदी बोहरा समूदाये खतना प्रथा सन्निभानाम् धार्मिक प्रकरणानां तर्कवाद श्रवणपरं निर्णयं विधास्यति

ध्येयमस्ति यत् विगतवर्षे शीर्षन्यायालयेन केरलराज्यस्य प्रसिदधे अयप्पा मन्दिरे दशवर्षत पञ्चाशदवर्ष आय् पर्यन्तानां महिलानां बालिकानां च प्रवेशे चिरात् प्रवर्तित प्रतिबन्ध अपाक्र्वता प्रथेयं असंवैधानिकी प्रख्यापितासीत्

रफाल क्रय सम्बदधाः महत्वाधायिन तथ्या नैव प्रदर्शिता अतः प्नर्विचार याचिकामाध्यमेन प्रकरणस्य आपराधिकान्वीक्षणं न्यायालयसमक्षं भवेदिति याचिकाकर्त् अध्यर्थना आसीत्

त्रयाणां न्यायाधीशानां खण्डपीठेन रफाल क्रय प्रकरणे प्राथमिकी पञ्जीकरणाहवानमपि निराकृतम् एतास् प्नर्विचार याचिकास् शीर्षन्यायालयस्य तन्निर्णय प्नर्विचारयित् अध्यर्थितमासीत् यस्मिन् न्यायालयेन प्रोक्तमासीत् यत् रफाल क्रय निर्णय सम्बद्धा प्रक्रिया नास्ति लेशमात्र सन्देह परा इति भाज दलम भारतीय जनता पार्टीति दलेन उच्चतमन्यायालयस्य रफाल प्रकरणे प्रदत्त निर्णय अभिनन्दित प्रोक्तञ्च मोदीप्रशासनस्य जय एष सत्यमेव जयते इति दलेनोक्तं यत् रफाल प्रकरणे विपक्षिदलेन पञ्जीकारिता पुनर्विचार याचिका शीर्षन्यायालयेन सम्प्रति निराकृता मोदीप्रशासने मिथ्यारोपार्थ कांग्रेसदलं राहलगान्धी चापि देशवासि समक्षं क्षमायाचनां क्रूताम् इति भाजपा दलं समीहते हरियाणा हरियाणायाम् अद्य प्रथमो मन्त्रिमण्डल विस्तारो विहितः दशमन्त्रिणां समावेशनं मन्त्रिमण्डलेऽस्मिन् सञ्जातमस्ति हरियाणाया राज्यपालेन एसएन् आर्य वर्येण चण्डीगढस्थे राजभवने अदय नूतनमन्त्रिण इमे पदगोपनीयतायै प्रतिश्राविता संसत्सव्रम संसदीय कार्य मन्त्री प्रहलाद जोशी संसद शीत कालीन सत्रारम्भात् प्राक् नवम्बर सप्तदशे दिनांके सर्वदलीयम् उपवेशनं समाकारयत् शीतकालीनं सत्रमिदं नवम्बर अष्टादश दिनांकत दिसम्बर मासस्य त्रयोदश दिनांकपर्यन्तं प्रकल्पयिष्यते बालदिवस कृतज्ञं राष्ट्रमदय प्रथमं प्रधानमन्त्रिणं पण्डित जवाहरलाल नेहरू वर्य तज्जयन्त्यवसरे स्मरति दिनमिदं बालदिवसरूपेणापि परिपाल्यते राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च पण्डितजवाहरलालनेहरूवर्यस्य जयन्तीम्पलक्ष्य तस्मै अश्रदधा सुमनांसि असमर्पितानि अत्रावसरे राष्ट्रपति राष्ट्रपतिभवने अद्य बालकान् नवाचार पदक्रमोन्म्खान् य्वोद्यमिन अमिलत्

र मेलकम नवत्रिशत्तमम् अन्तार्राष्ट्रिय मेलकं नवदिल्ल्यां प्रगतिमैदाने अदय प्रभृति समारब्धम् मेलकस्योद्घाटनं सूक्ष्म लघ् मध्यमोद्योगमन्त्री नितिनगडकरी वर्य अकरोत्